गतदिवसे केन्द्रीय स्वास्थ्य मंत्रिणा डॉ हर्षवर्धनेन कोविड संवर्द्धित प्रकरणानि सममेव कोविड सूच्चौषधाभियानम् अभिलक्ष्य एका उच्चतस्तरीया समीक्षामंत्रणा विहिता अद्य विश्व स्वास्थ्य दिवसो वर्तते दिवसस्य अस्य एतद्रवर्षीय मूलवाक्यो वर्तते अशेषे हि विश्वे प्रत्येकस्य मानवमात्रस्य कृते स्वस्थ सम्पुष्ट स्वास्थ्य संरचना निर्माणम् इति साम्प्रतं यावत् चत्वारिंशल्लक्षोत्तर अष्टकोटि संख्याकेभ्य लाभार्थिभ्य सृच्चौषधं प्रदत्तम् चंडीगढ़ प्रशासनेन कोरोनासड्क्रमणस्य नूतनानि प्रकरणानि निध्याय रात्रि संचार रोधादेश प्रवर्तित कोविड् संचेतना सन्देश प्रियाः श्रोतारः कोरोना महामारीं विरुध्य देश ऐक्य भावनया युध्यते भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्प स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकद्रता परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

परीक्षायो चर्चा इत्यस्य कार्यक्रमस्य प्रथमम् इदं विशालतमं संस्करणं दृश्यश्रव्यपरान्तर्जालीयमाध्यमेन समायोजयिष्यते कार्यक्रमस्य अस्य अंतर्गतं प्रधानमन्त्री मनोविषादं विना परीक्षाया सज्जताथं छात्रै सह संवाद विधास्यति कार्यक्रममेतत् निध्याय स्वीयट्वीटसंदेशमाध्यमेन श्री मोदी प्रोक्तवान् यत परीक्षां सम्मुखीकुर्वन्द्रि छात्रै शिक्षकै अभिभावकैश्च साधं स्मरणीय लाभप्रद उपयोगी च विचारविनिमयो भविष्यति सहैव प्रधानमन्त्रिणा दृश्यश्रव्यचित्रमपि प्रदर्शितमस्ति कार्यक्रमस्य अस्य विषये केन्द्रीयशिक्षामंत्रिणा रमेशपोखरियालनिशंकेन भणितं यत् एष प्रथम अवसरो वर्तते यदा एकाशति देशानां विद्यार्थिभि रचनात्मक लेखन प्रतियोगितायामपि भागो गृहीत

स्वास्थ्य मंत्री गतदिवसे केन्द्रीय स्वास्थ्य मंत्रिणा डॉ हर्षवर्धनेन कोविड संवर्द्धित प्रकरणानि सममेव कोविड स्च्चौषधाभियानम् अभिलक्ष्य एका उच्चतस्तरीया समीक्षामंत्रणा विहिता अस्मिन् उपवेशने छत्तीसगढ दिल्ली हरियाणा हिमाचल प्रदेश झाारखंड कर्नाटक गुजरात मध्यप्रदेश महाराष्ट्र पंजाब राजस्थानप्रदेशानां स्वास्थ्यमंत्रिण अतिरिक्त मुख्य सचिवा मुख्यस्वास्थ्यस्तचिवाश्च समुपस्थिता आसन् अस्मिन् अवसरे डॉ हर्षवर्धनिन विज्ञापितं यत् कोविड सूच्यौषधानि देशे सर्वत्र पर्याप्तमात्रायां समुपलब्धानि सन्ति एवंच कस्मिन् अपि राज्ये सूच्यौषध नैयून्यस्य सूचना न प्राप्ता